प्रधानमंत्री नरेन्द्रमोदी उक्तवान यत् आत्मनिर्भर भारताभियानम वंचितजनाना भविष्यनिर्माणहेतु वर्तते सूचना प्रौद्योगिकी मन्त्रिणा रविशंकर प्रसादेनोक्तम् यत् राष्ट्रस्य न्यायव्यवस्थाया उल्लंघयितृन् प्रसारमाध्यमान् विरूदध्य सर्वकार कठोरतमान् पदक्षेपान् उत्थापयिष्यति आसंसारे सर्वाधिक द्रतगत्या सुच्यौषधदानाभियानम् भारते एव प्रचलति साम्प्रतं यावत् सप्ततिलक्षाधिका जना लाभान्विता निर्वाचनायोगेन तमिलनाड़ राज्ये निष्पक्षमतदान सनिश्चयाय तद्विषयिक सन्नद्वताया च समीक्षा कृता अमेरिका देशेन म्यामां देशे विसत्ताकरणम् अभिलक्ष्य तद्देशाय दीयमाना सहायता अवरोधिता

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सड़कल्पं स्वीकृर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्य परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

इत्यस्य उत्तरदक्षिणयो तटयो सस्त्रातिविधिं रोड्यम् सहमति प्रकटिता

राजनाथ सिंह न्यगादीत् यत् चीनभारतयो सहमति ह्य रात्रौ एव प्रवर्तिता स उक्तवान् यत् अस्य अनुबन्धस्य प्रयोजनम् विगताब्दस्य अवरोधस्य पूर्ववर्तीस्थितिं प्रापणम् अस्ति

पं दीनदयालोपाध्यायस्य पृण्यतिध्यावसरे भाजपा दलीय सांसदान संबोधयता श्रीमोदीना भणितं यत आधारभृतसंरचना क्षेत्रे जायमानं परिवर्तनं नागरिकानां जीवनं सुकरं करिष्यति जगति च भारतस्य उन्नततमा स्थिति वरिवर्धमाना अस्ति यस्मिन् सर्वोऽपिभारतीय गर्वान्वितो भवित् शक्नोति प्रधानमन्त्रिणा अन्त्योदय विचारदातृणाम् उपाध्यायपादानां विचाराणि दर्शनं च सम्प्रत्यपि प्रासंगिकानि सन्ति इतिउक्तम्

स्वकथने स अभाषत् यत ट्विटर फेसबुक व्हाट्सऐप लिंक्डइन इत्यप्री कृते व्यावसायिक स्वातंत्र्यमस्ति परं एभि भारतीय संविधानस्य व्यवस्थानां विरूपणं सोढ़ं न शक्ष्यते स अकथयत् सामाजि संचार माध्यमेन सामान्य जना सशक्तिभृता सन्ति अपि च डिजिटल भारतम् इतिआभासीय कार्यक्रमम् अभिलक्ष्य अस्य महती भूमिका वर्तते परं स्वतन्त्रताया व्याजेन आपराधिक कृत्या क्षम्या न सन्ति स उक्तवान् यत् सामाजिक संचार माध्यमेन विगतमासस्य षड्विशति दिनांकीय हिंसक संदेशानां प्रचारं न रूद्धम् यत् संविधानानसारि नास्ति

संख्येय विश्वापेक्षया सर्वाधिका वर्तते कार्यमिदम अमरीकादेशे सप्तविंशति दिवसे ब्रिटेनदेशे च अष्टचत्वारिशत दिवसे सम्पन्नम् स्वास्थ्यमन्त्रालयेन निष्पादितं यत् देशे अधनावधि सप्तदशसहम्राधिक सप्तति लक्षमिता जना अनया सच्यौषधिना लाभान्विता

मन्त्रालयेन प्रतिपादितम् यत् त्रयोदशराज्येष् केन्द्र शासित प्रदेशेष्वपि प्रायश पञ्चषष्ट्यधिक्व न्वास्थ्यकर्मिभि सृच्यौषध अधिगत तत्रद्द पुड्चेरीप्रान्ते इयं संख्या निम्ना वर्तते देशे कोविड एकोनविंशत्या महामार्या स्वस्थतामिति सम्प्रति सप्तनवति दशमलव द्वि षट्टमिता अंकिता विगतास् चतुर्विंशतिहोरास् प्रायश द्वादश सहस्रं जना स्वस्थीभूता संक्रमितानां जनानां संख्या द्विषष्ट्यधिकपञ्चशतोत्तर द्विचत्वारिशत्सहम्रोत्तरक्तिक्षमिता जाता या संक्रमितानां प्रतिशतताया एक दशमलव त्रि एक मिता अस्ति अनेन संक्रमणेन ह्य अष्टाधिक्क्रिशतं रोगिण कालकवलिता तमिलनाड चनाव समीक्षा मुख्य निर्वाचन आयुक्तेन सुनील अरोड़ावर्येण प्रोक्तं यत् देशे स्वतंत्र निष्पक्ष प्रलोभनमुक्त मतदानं कारयित् निर्वाचन आयोगस्य दायित्वं विद्यते चर्स्क्रिप्रान्ते द्विदिवसात्मक्या मतदानप्रक्रियाया समीक्षानन्तरं अद्य वार्ताहरा साकम मुख्य निर्वाचन आयुक्तेन कथित यत् सर्वेषा राजनीतिकदलानां सर्वविध अन्रोधेष च विधिवत विचार कृत विस्तृता समीक्षापि च विहिता तेन इदमपि प्रकाशितं यत् कांश्रित दला ब्रांछितं आसीत यत् मतगणना प्रक्रिया मतदानदिवसस्य द्विदिवसान्तर्गतमेव भवेदिति मतदान प्रक्रिया दिवसे मतदान स्थलेष् केंद्रिय सशस्त्र आरक्षि बलानि तथा अन्य राज्याणाम विशेषपर्यवेक्षका नियुक्ता भविष्यन्ति

पश्चिम बंगाल अिमतशाह गहमन्त्रिणा अमित शाहेन निगदितं यत पश्चिम बंगालस्य जना राज्ये सर्वकार परिवर्तनस्य निर्णय स्वीकत

श्रीशाहेन तुणमूल कांप्रेस नेत्री मुख्यमंत्री च ममता बनर्जी वर्या राज्यस्य निर्धन जनान सुविधा अदानाय आरोपिता

यदि भाजपादलं सत्तायां आगमिष्यत् तदा इमां योजनां योजयिष्यति

बाइडनवर्येण उक्तं यत् म्यामां देशस्य सक्रि शासकान् अभिलक्ष्य कठोरनिर्णयाय सन्नद्व अस्तिअस्मदेशः तेनोदीरितं यत् निर्वाचित सर्वकारस्य सत्ताच्युताय कारणभृता निर्देशदातारश्च नेतार तेषां सन्निकटीय सम्बन्धिनश्च प्रतिबन्धिता स्य् इति निर्देशात्मकादेशे बाइडन पूर्वमेव हस्ताक्षरितवानिति राष्ट्रपतिना बाइडनेन निगदितं यत् म्यामां देशं प्रति क्रियमाणासु नद्यीतिक वस्तुस् देशोऽयं प्रतिबन्धम् विधास्यति परं औषधादिष् जनहित सामग्र्यादिष् च नक्ष राष्ट्रपतिना बाइडनेन संख्यिमृहं प्रोक्त यत् कारागारपातिता नेतार तेषां कार्यकर्तारश्च अविलम्बद्ध मोचितव्या सहब शासनभारमपि त्यक्त्वा लोकेच्छाया सम्मानमपि कुर्वन्त्वति